गृहमन्त्रिणा अमितशाहेन आर सी ई पी इति क्षेत्रीय व्यापकार्थिक सहभागितायां नैव सम्मेलनस्य भारतस्य निर्णय सुष्ठ प्रतिपादित रक्षामंत्री राजनाथसिंह अद्य रूसदेशस्य राजधान्यां मॉस्कोनगयाँ सैन्यसहयोगे सैन्य प्रौद्योगिकी सहयोगे च भारत रूसयो नवदश अन्तर्प्राशासनिक योगोपवेशनस्य सहाध्यक्षं करिष्यति प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत् यत् भारतं आर सी ई पी इति क्षेत्रीय व्यापकार्थिक सहभागितायां नैव सम्मिलितो भविष्यति सहमति वार्ता प्रसंगे भारतस्य समस्या प्रमुख विषयाश्व नैवात्र समाहिता इदं हि कारणं प्रधानमन्त्रिणा आर सी ई पी इत्येतस्मात् पृथक्करणस्य प्रोदीरितम् बैंकोक नगरे समनुष्ठिते क्षेत्रीय व्यापकार्थिक सहभागिता शिखरोपवेशने सम्भाषमाणः प्रधानमन्त्री घोषणामिमां प्रकाशितवानु अनन्तरं वार्ताहै वार्ता प्रसंगे विदेशमन्त्रालयीय सचिवया विजय ठाकुर सिंहेन निर्णयोऽयं राष्ट्रहितं निध्याय विहितमस्ति इति प्रोदीरितम् अमुनोक्तं चीन आसियान देशै समं आर सी ई पी इति साहमत्यं तदीयं मौलिकोदेश्यं न हि दर्शयति एतन्निष्कर्ष नैव सन्त्लितोऽस्ति थाईलैंडदेशस्य यात्रां विधाय स्वदेशं प्रत्यागत प्रधानमन्त्री शाह गृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् क्षेत्रीय व्यापकार्थिक सहयोगात् पृथकता सम्बद्धो भारतस्य निर्णय प्रधानमन्त्रिण नेरेन्द्रमोदिन दुढ़नेतृत्वं देशहितानां सर्वास् परिस्थितिषु सुरक्षाया अदम्योनिर्णय प्रतीयते एकस्मिन् ट्वीट सन्देशे श्रीशाहेन लिखितं यत् श्रीमोदिन अनेन निर्णयेन भारतस्य कृषकेभ्य विनिर्माण दग्धोत्पादनम् अयस्कोद्योगक्षेत्रेभ्य च साहाय्यं प्राप्स्यते किशन रेड्डी जम्मुकश्मीरस्य प्रतिनिधिमण्डलम गतदिने नवदिल्ल्यां गृहमंत्री राज्यमंत्री जी किशन रेड़डी वर्येण सह अमिलित अस्मिन् प्रतिनिधिमण्डले केन्द्रशासितप्रदेशस्य प्रधानजना जम्मुकरमीरप्रोप्रेसिव पीप्ल्स फ्रंट पहाडीयुथएसोसिएशन अनंतनाग बाराम्ला कूलगाम क्षेत्राणां ब्लॉक डेवलपमेंट काउंसिल इत्यस्य प्रतिनिधय उपस्थिता आसन् श्री रेड्डी वर्य प्रतिनिधिमंडलं शान्ति समृद्धिमधिकृत्य आगामि योजनानां विषये असूचयत् तोमर कृषिमंत्री नरेन्द्रसिंहतोमर अवादीत् यत् कृषकाणं कल्याणार्थं देशस्य प्रगत्यां च कृषि वैज्ञानिकानां महत्वपूर्णा भूमिका वर्तते